अवसरक्रिमन् राष्ट्रपति रामनाथकोविन्द जम्मू कश्मीर ब्रांस स्थल क्विरगिल युद्ध स्मारकस्य यात्रा विधास्यति अथ च ऑपरध्मि विजय इति सैन्याभियानावधौ हुतिंगत्व्यि सैनिक्खि श्रद्धांजलिं समर्पयिष्यति राष्ट्रियराजधान्यां दिल्ल्यां प्रधानमन्त्री हृतिंगतश्रि भटक्षि श्रद्धांजलिं समर्पथिष्यति

लक्ष्यक्वीताक्रमणं सन्दर्भयता सैन्यप्रमुखणीसंचतितं यत् यदि पाकिस्तानं भारतं विरूध्य छद्य यद्धं समर्थयिष्यति तर्हि कार्याचरणमिंद पन प्रवर्तयिष्यता द्रास स्थलकाशवाण्या सह सम्भाषणक्रमज्ञिनरल रावतमिएतत् व्याहृतम्

विधध्यक्रिमिंद तलकत्रयोच्चर विधाकित्वा परिज्ञायत विधाकि विषयकं परिचर्चा प्रत्युत्तरता विधिमन्त्रिणा रविशंकर प्रसाद्व प्रोक्त यत् तलकत्रयोच्चारं विरुध्य प्रतिबन्धात्मकस्य विध्यक्रिस्य उपस्थापनं महत्वपूर्णमासीत् सप्तदशोत्तरद्विसहस्रतमविर्षे उच्चतमन्यायालयस्य निर्णयस्थानन्तर मपि प्रथर्य दिये नानाभागष्ट प्रवर्तत विधिमन्त्रिणा स्पष्टीकृतं यत् विध्यक्तिमिंद कञ्चिदपि समृदायं धर्म वा विरुध्य नैवास्ति

ग़हाणि नगरावासमन्त्रालयर्व प्रधानमन्त्री नगरावास योजनाया अन्तर्गतं नगरीय निर्धनानां लाभार्थं भ्योऽपि चत्वारिंशत् सहम्राधिकैकलक्षमिताल्पमूल्यात्मका वासाना निर्माणार्थम् अन्मोदितम्

षट्चत्वारिशत् दिवसात्मिका वार्षिकी यात्रा अगस्तमासस्य पञ्चदश विवसप्रिणताम् एष्यति